प्रधानमन्त्री प्रधानमन्त्री नरेन्द्रमोदी प्रत्य ादयत यत कोरोना महामार्याः सम्चित उ चारार्थं जगत भारतस्य साहाय्यं समीहते यतोहि अल मूल्ये कोरोणा सूच्यौषधानां आ ूर्तिः भारतेनैव सम्भवा प्रधानमन्त्री नरेन्द्र मोदी न्यगादीत यत अग्रिमेष् कति य सप्ताहेष् भारतं कोरोनासूच्यौषधं प्राप्स्यति एतेन महामार्याः रक्षणं भविता असौ अद्य संक्रमणम अवलम्ब्य आयोजितं सर्वदलीयम उ वेशनं सम्बोधयति स्म अन्तर्जाल माध्यमेन मेलनस्य अध्यक्षतां क्र्वन श्रीमोदी अब्रवीत यत वैज्ञानिकाः सबलं विश्वस्ताः सन्ति यत ी ते आगामिष् सप्ताहेष् कोरोनो चाराय सूच्यौषधस्य विकासं करिष्यन्ति प्रधानमन्त्रिणा विज्ञा तं यत महामारि रोधाय निमिर्तानि अष्ट सूच्यौषधानि विकास रीक्षणस्य विभिन्नेष् चरणेष् सन्ति अन्सन्धातृ वैज्ञानिकैः सूच्यौषधानां अन्मति प्राप्तेरनन्तरं सूच्यौषधीकरण कार्यक्रमारम्भो विधास्यते

यानाम अन् ालनम अस्ति महदावश्यकम अवधेयास दं विद्यते यत महामार्याः स्थितिं रिचर्चयित्ं आकारितं सर्वदलीयम एतद् वेशनं होरात्रयं यावत प्रचलितम यत्र लोकसभा राज्यसभयोः विभिन्नदलानां सदनस्य नेतारः सहभागिताम आवहन केन्द्रीयोमन्द्री अमितशाहः राजनाथसिंहः हर्षवर्धनश्च मन्त्रणायां सम् स्थिताः अवर्तन्त कांग्रेस ज्ञेतारं अधीर रंजन चौधरीं ग्लाम नबी आज़ाद समेत्य नैकेषां दलानां नेतारः दृश्य श्रव्य प्रणाल्या अत्रो वेशने प्रतिभागिताम आवाहन कोरोना भारतेन कोरोना प्रको नियमने प्रशंसार्हा सफलता अधिगतास्ति इदानी यावत नवतिलक्षमिताः जनाः स्वस्था अभूवन स्वस्थतामानम संवध्य चत्र्णवति दशमलव दवि शून्य रिमितम संवृत्तम साम्प्रतं देशे स्वस्थीभूतानां संख्या उ चाराधीनानां अ क्षया द्वाविंश ग्णिता वर्तते विगते अहोरात्रे संक्रमणात मुक्तिमावप्तवतां संख्या प्रायः त्रि चत्वारिंशतः सहस्रमिता संजाता

स्वास्थ्य मन्त्रालयो ब्रूते यत कोरोनातः संजाते मृत्युमानेअ अ ाचितिः दरीहष्टा मृत्युप्रतिशतता इदानी एक दशमलव चत्ः संच मिता अस्ति मन्त्रालयेन ज्ञापितं यतः विगते अहोरात्रे चत्वारिंशदधिक ञ्चशतं संक्रणणग्रस्ताः दिवं प्रयाताः जम्मूकश्मीरः केन्द्रशासिते प्रदेशे जम्मूकश्मीरे डीडीसी इति जन द विकास रिषदः तृतीयचाक्रिकं मतदानं सम् न्नम अस्मिन चरणे त्रयस्त्रिंशते निर्वाचन क्षेत्रेभ्यः मतदानानि समन्ष्ठितानि एतेष् षोडश कश्मीरो त्यकायां अथ सप्तदश निर्वाचन क्षेत्राणि जम्मूक्षेत्रस्य आसन ञ्चाधिक त्रि शतं प्रत्याशिनः स् र्धन्ते प्रदेशे आहत्य षट् चत्वारिंशदुतर द्वि सहस्रं मतदानकेन्द्राणि सन्ति अवस्थापितानि अस्मदीयो वार्ताहरः समसूचयत यत े अनन्तनाग जन दे अ नी ार्टीति दलस्य प्रत्याशिने आतंकिभिः गोलिकाक्रमणं विहितम व्रणितः सागाम कोकरनाग निर्वाचन क्षेत्रस्य प्रत्याशिः अनीस उल इस्लामः चिकित्सालयं प्रविष्टः साम्प्रतं तदीया स्थितिः स्थिरा वर्तते ब्रेक सम्प्रतिवार्ता भवन्त आकाशवाणीत आकर्णयन्ति तेलंगाना बह़तर हैदराबाद नगर निगमस्य सार्धैक शत सम्भागे स्थितानां त्रयोविंशति आसनानां निर्वाचन रिणामाः सम्द्घोषिताः

अवशिष्टानाम आसनानां मतगणना प्रचलति

असौ महाविकास अघाड़ी घटकदलस्य कांग्रेस प्रत्याशिः अस्ति नाग र सम्भागस्य स्नातक निर्वाचनक्षेत्रीयं आसनं अभिजीतेन भाज दलप्रत्याशिनं राजित्य स्वायत्तीकृतम जयानन्तरं वार्ताहरान सम्बोधयन असौ प्रावोचत यत निर्वाचन रिणतिः इयं महाविकासअघाड़ी संय्ति दल समर्थनं द्योतयति निर्वाचप्रचारावधौ तत्सहयोगे रतेभ्यः जनेभ्यः असौ धन्यवादं व्याहरत उतर प्रदेशः सद्य एव समन्ष्ठिते उत्तर प्रदेश विधान सरिषदः निर्वाचने भाज ादलेन आसनत्रयं विजितम अत्र अध्या क निर्वाचनं क्षेत्राणां षट् आसनेषु निर्वाचनं विहितं आसीत अत्रांतरे समाजवादी ार्टीति दलेन एकम आसनं जितम तत्राव आसनद्वयं निर्दलीयप्रत्याशिनौ विजितवन्तौ ध्येयमस्ति यत्र अध्या क निर्वाचन क्षेत्रतः भाज ादलेन प्रथमं तावत स्वीये निर्वाचन चिह्ने निर्वाचनं स्थितम आरबीआई भारतीय रिज़र्व बैंकस्य अध्यक्षः शक्तिकान्तदासः अवदत यत मौद्रिक नीति समितिः बैंकानां नीतिगत मानं चत्ःप्रतिशतस्य स्तरे एव स्था यिष्यति इति सर्वसम्मत्या विनिर्णितवती श्रीमता दासेनोक्तं यत मौद्रिक नीति समितेः विचार आसीत यत मुद्रास्फीतेः साम्प्रतं उच्चस्तरे अवस्थानस्य सम्भावना अस्ति यद्यपि खरीफ शस्यानां र्याप्त उत् दिनस्य सम्भावनाम आलक्ष्य अल काले प्रयोगहीनावस्थां प्राप्यमाणानं वस्तूनां मूल्ये शीतर्तौ अ चितिः सम्भाव्यते असौ सबलं प्रत्य ादयत यत रिज़र्व बैंकः वित्तीयक्षेत्रस्य स्थिरतां यथावस्थं स्था यित्ं सर्वथा अस्ति वचनबद्धः एतदर्थं असौ यथाशक्ति प्रयतिष्यते